कोलकाता पत्तन न्यासस्य सार्धैकवर्षपूर्त्यवसरे प्रधानमन्त्रिणा षट् शत कोटि रूप्यकात्मिका परियोजना श्भारब्धा स्वामी विवेकानन्दस्य जयन्त्यवसरे उत्तरप्रदेशे राष्ट्रिय य्वा महोत्सव प्रारब्ध जम्मूकश्मीरे प्लवामा जनपदे सेनया साकं संघर्षे आतंकित्रयं मारितम्

पश्चिम बंगाले रामकृष्ण मिशनस्य मुख्यालये बेल्र मठस्य एकस्मिन् कार्यक्रमे श्रीमोदिनोक्तं यत् संशोधन विधे समृत्थित विवाद कारणात् विश्वं पाकिस्ताने धार्मिक अल्पसंख्यक तर्जना विषये ज्ञातम् तेन दःखं प्रकटितं यत् यूनां वर्ग प्रकरणेऽस्मिन् भ्रमास्पद स्थित्यां वर्तते तेन भणितं यत् विधेयकोऽयं नागरिकता प्रदानार्थं विनिर्मितः तेनोक्तं यत् नूतनविधे कस्यापि हितानां क्षति न भविष्यति